झारखण्डे विधानसभा निर्वाचनानां प्रथम चरणाय प्रचाराभियानानि पूर्णतां गतानि

महाराष्टमशपथग्रहणसमारोह शिवसेनाध्यक्ष महाराष्ट्र विकास अघाड़ी नेता च उदधव ठाकरे अदय सायं दादरस्थे शिवाजी उद्यान परिसरे महाराष्ट्रस्य म्ख्यमन्त्रित्वेन शपथं गृहणाति अष्टाशीत्यधिक दृविशत सदस्यात्मिकायां राज्य विधान सभायां शिवसेनाया षट् पञ्चाशत् एन्सीपी दलस्य चत्ष्पञ्चाशत् कांग्रेस् दलस्य च चत्श्चत्वारिशत् विधायका सन्ति

शपथ ग्रहण समारोहे विभिन्न दलाना नेतार उद्योगिन कलाकारा अन्ये च विशिष्टा जना उपस्थिता भविष्यन्ति शिवसेनया प्रायश चत्श्शतं कृषका अपि अस्मिन् समारोहे उपस्थात्म् आमन्त्रिता सन्ति झारखण्डमनिर्वाचनम झारखण्डे विधानसभा निर्वाचनानां प्रथम चरणाय प्रचाराभियानानि पूर्णतां गतानि

सर्वेषामपि दलानां नेतार मतदातन् आक्रष्ट् यथाशक्ति प्रयतन्ते

एवमेव म्ख्यमन्त्री रघ्बर दास झारखण्ड मुक्ति मोर्चा प्रमुख शिब् सोरेन झारखण्ड विकास मोर्चा दलाध्यक्ष बाबुलाल मंराडी अन्ये च नैके प्रमुख नेतार विभिन्न नैर्वाचनिक क्षेत्रेष् जनसभा संबोधितवन्त अदय तृतीय चरणात्मक निर्वाचनाय प्रत्याशिनाम परावर्तनस्य अपि अन्तिमो दिवस वर्तते डिसेम्बर् मासस्य दवादशे दिवसे एतच्चरणार्थ मतदानानि भविष्यन्ति

मतगणना आगामि मासस्य त्रयोविंशे दिनाइके भविष्यति

हिमाचलप्रदेशे पर्वतीय क्षेत्रेष् हिमपातात् अधश्च समतलीय क्षेत्रेष् वृष्ट्या च शीतलहरी प्रवर्धिता

इति वार्ताः